प्रधानमन्त्री सम्प्रार्थयत् यत् येऽपि अर्हा ते सर्वे सूच्यौषधलाभं स्वीकुर्वन्तु

अस्मिन् चक्रे वरिष्ठ नागरिकेभ्य तथा च पञ्चत्वारिंशत्त वयोधिक जना सूच्यौषधलाभ सम्प्राप्स्यते

नागरिका अस्मिन् पटले पञ्जीकरणं कृत्वा सूच्यौषध लाभं कोविन् द्वि दशमलव शून्यम् इति पटलस्य अथवा आरोग्यसेत् प्रभृतिभिरन्य चरिष्णुतन्त्र यत्र क्त्रापि प्राप्त् शक्नुवन्ति दशसहस्राधिकेषु सर्वकारीय चिकित्सालयेषु सूच्यौषधस्यास्य लाभ निश्शुल्कं प्राप्स्यते तथा च निजीचिकित्सालयेषु जना सार्धद्विशतमितं धनं दत्त्वा अस्य लाभं स्वीकर्त ं शक्ष्यन्ति

एकस्मिन् ट्वीटलेखे प्रधानमन्त्री सम्प्रार्थयत् यत् येऽपि अर्हा ते सर्वे सूच्यौषधलाभं स्वीकुर्यु इदं गौरवपूर्ण वर्तते यत् अस्माकं चिकित्सका व ्राजनिकाश्च कथमेव अल्पे एव काले कोविड् नवदशमहामारीं विरुध्य दृढतया कार्यं कृतवन्त परिचारिका भगिनी पी निवेदा प्रधानमन्त्रिणे कौवस्सीन् सूच्यौषधं प्रदत्तवती प्रधानमन्त्री आसामस्य अंगवस्त्रं धृतवान् आसीत् यद्धि आसाममहिलानाम् आशीर्वचस्स्वरूपं वर्तते

तदर्थं कृषकान् अतिरिच्य सार्वजनिक निजी सहकारी क्षेत्राणाम् अपि महती भूमिका वर्तते स वित्तीय संकल्प पत्रे कृषि क्षेत्रेष् विहितान् परिष्कारान् अभिलक्ष्य एकस्यां अन्तर्जालीय संगोष्ठ्यां ब्रवन्नासीत् स न्यगादीत् यत् अध्नातन भण्डारण सौविध्यम् कृषकानां स्वग्रामस्य समीपे एव स्निश्चितं भवेत् अपि च ग्रामेष् कृष्य्द्योग समूहानां संख्याऽपि वर्धितव्या

अयं कार्यक्रम दृश्यश्रव्यसंवाद प्रणालिकया आयोजयिष्यते प्रधानमन्त्री छात्रअध्यापक अभिभावक्ष्मि च सार्धं आगामिपरीक्षा अभिलक्ष्य संवाद विधास्यति गतवर्षस्य द्वादशकक्ष्याया छात्रस्य वष्णव अग्रवालस्य अनुसारि प्रधानमन्त्रिणा तस्य दौविध्यानि द्रीकृतानि तथा च प्रधानमन्त्रिण परामर्शे परीक्षाभयात् स मुक्तो जात

संचार मन्त्रालयेन प्रतिपादितं यत् सघोषविक्रयोऽयं नूतन आवृत्ति समूहानां कृते प्रवर्तिष्यते अनेन विक्रयेण आबंटित स्पद्ध्रिम् इत्यस्य समयावधि विंशतिवर्षाणि भविष्यन्ति महिलादिवस अन्ताराष्ट्रिय महिलादिवस मार्चमासस्य अष्टमे दिने आमन्यते अद्य प्रारभ्य आकाशवाणी भवदृभ्य विविधक्षेत्रेभ्य सफलतममहिलानां वृत्तानि आनेष्यति अन्यविकसितदेशापेक्षया भारते विज्ञान प्रविधि अभियान्त्रिकी गणितेष् सर्वतोधिका महिलास्नातका सन्ति

स्वस्थीभूतानां संख्या सप्तलक्षोत्तर एककोटिमिता संवृत्ता विगते अहोरात्रावधौपंचदशसहस्रं अभिनवन्तनानि कोरोना प्रकराणि समक्षमागतानि भारत पाक भारत पाकिस्तान देशयोर्मध्ये समुद्घोषित संघर्ष विराम संयुक्त अरब अमीरात देशेन स्वागतीकृत देशस्य विदेशमन्त्रालयीय वक्तव्ये प्रतिपादितं यत् पदक्रमोऽयं देशयोसुरक्षाय स्थिरतायसिमृद्धिम् अवाप्त् च महत्वपूर्णोऽस्ति

स्वच्छसर्वेक्षणम् आवास नागरमन्त्रालयेन अद्य नवदेहल्याम् एकस्मिन् प्राविधिक कार्यक्रमे स्वच्छसर्वेक्षणस्य षष्ठं संस्करण समुद्घाटितम् स्वच्छसर्वेक्षणं वार्षिकस्वच्छता मूल्यांकनाय षोडशोतरद्विसहस्रतमे ख्रीष्टाब्दे प्रारब्धम् आसीत् अन्तर्जालीय सम्मेलने भाषमाण आवास नागर मन्त्रालयस्य सचिव द्र्गाशंकरमिश्र प्रावोचद् यत इदं सर्वेक्षणं नगराणां मध्ये स्वच्छ प्रतियोगि भावनां जनयति

भारतीय मानक ब्यूरो इत्यस्य तृतीय शासि परिषद सम्मेलने सम्बोधयता तेन प्रतिपादितं यत् मानकीकरणं प्रति राष्ट्रस्य दृष्टिकोणे परिवर्तनम् आवश्यकमस्ति

साम्प्रतं मानकम् अपि आर्थिकविकासाय चतुर्थमन्त्ररूपेण स्वीक्रियतामु

प्रधानमन्त्री सम्प्रार्थयत् यत् येऽपि अर्हा ते सर्वे सूच्यौषधलाभं स्वीकुर्वन्तु